दिसम्बर मासस्य त्रयोदश दिनांक पर्यन्तं समनुवर्तमाने सत्रावधौ विंशतिः उपवेशनानि समायोजयिष्यन्ते संसदः द्वयोः सदनयोः लोकहिताय देशोत्कर्ष च निध्याय रचनात्मक विषयेष् परिचर्चा भविष्यतीति आशां प्रकाशितवान् प्रधानमंत्री श्रीनरेन्द्रमोदी सममेव प्रधानमन्त्रिणा सर्वाण्यपि दलानि समाश्वासितानि यत् तदीय प्रशासनं सर्वाः समस्याः आध्रत्य परिचर्चार्थं सज्जीभूतमस्ति संसदः शीतकालीन सत्रात् प्राक् समाचरिते सर्वदलीयोपवेशने प्रधानमन्त्री प्रावोचद् यत् परिचर्चा संवादश्च संसदः प्रमुखोद्देश्यः वर्तते

बोबड़े न्यायाधीशः बोबड़ेवर्यः अद्य देशस्य सप्तचत्वारिंशत्तमं न्यायाधीशप्रमुखपदम् सम्भालयिष्यति राष्ट्रपतिना रामनाथकोविन्देन प्रातः सार्धनववादने राष्ट्रपतिभवने असौ प्रतिज्ञापयिष्यते बोबड़ेवर्यः न्यायाधीशस्य रंजनगोगोई वर्यस्य स्थानं ग्रहीष्यति यो हि गतदिने एव न्यायाधीशप्रमुख पदात् एतस्मात् सेवानिवृत्तः जातः बोबड़ेवर्यस्य कार्यकालं अष्टादशमासं यावत् भविता श्रीलंकाः श्रीलंकायाः पूर्वरक्षा सचिवः गोताबाया राजपक्षे राष्ट्रपतिपदस्य निर्वाचनं विजितवान् असौ प्राक्तन राष्ट्रपतेः महिंदा राजपक्सेवर्यस्य भ्राता वर्तते गोताबाया राजपक्षे अद्य राष्ट्रपतिपदस्य गोपनीयतायाः शपथवचनं स्वीकरिष्यति अम्नोक्तं यत् श्रीलंकायां न्वारम्भो विधास्यते देशवासिनः तस्मिन् सह भागितां निर्वक्ष्यन्ति